प्रधानमन्त्री मोदी ह्य केवडियां प्रति अष्ट रेलयानेभ्यो हरितध्वजप्रदर्शन पूर्वकं गमनान्मतिं प्रायच्छत् प्रोक्तं स्थानीय जनेभ्यो वृत्यवसरा अनेन समुपकल्पयिष्यन्ते राष्ट्रिय राजधान्यां दिल्ल्याम् दश मासानन्तरं विद्यालया समुद्घाटविष्यन्ते शिक्षामन्त्रिणा ट्वीटमाध्यमेन अस्ति संसूचितम्

आस्ट्रेलिया द्वितीये पर्याये क्रीडकत्रयस्य हानौ त्रयोविंशत्यधिक्विशतं धावनांकान् समार्जयत्

ध्वेयमस्ति यत् एत ेलयाना े स्टैच् ऑफ युनिटि इति एकात्म भारत प्रतिमां प्रति यात्रा अतीव सारल्येन सुगमतया च सम्पत्यस्यते अमुना दिवसोऽयं भारतीय रेल विभागदृशा ऐतिह्यत्वेन प्रख्यापित राष्ट्रयि जनतान्त्रिक संयुति प्रशासनम् अध्ना स्निश्चितीकरोति यत् भारतीय रेलयानानि ने केवलं आत्मनिर्भरतां सम्पादयुयु अपितु पर्यावरणानु कूलतां च विद्धयु श्रीमोदिना अत्र स्पष्टीकृतं यत् आगामिकाले लक्षशो जना अत्रत्य यात्रां सम्पादयिष्यन्ति येन हि स्थानीयजनेभ्यो वृत्यवसराश्च भवितार समुपकल्पिता